सत्रमिद सम्बोधयन प्रधानमन्त्री नरेन्द्रमोदी ऐतिहासिकोद्वोषणामकरोत् यस्मिन् पूर्वीय क्षेत्राणां विकासमधिकृत्य भारतं रूसाय एकार्बद अमेरिकी डॉलर राशिं प्रदास्यति प्रधानमन्त्रिणोक्तं यत् भारतेन स्वीय एक ईस्ट जीतौ पूर्व एशिया विषये सक्रिय विचार प्रका त्रीऽस्ति अद्यतन घोषणया एक क्षॉर ईस ाइति नीतिरपि समारब्धा नीत्युद्धोषणा अस्माकीनामार्थिकीं क्र जीतिं नवोन्नयतां प्राप्स्यति रूसेन समं भारतस्य सम्बन्धं प्र प्राचीनं प्रत्यपादयन् प्रधानमन्त्री अचकथत् यत् एवं भृतोऽयं प्रथमो भारतदेश येन व्लादिवोस्तोके वाणिज्य दृतावास स्थापित पूर्वीयार्थिक मञ्चोत्सवात् पृथक प्रधानमन्त्री जापानं मलेशियां समेत्य अन्य राष्ट्रप्रम्खान् चाप्यमिलत् द्विपक्षीयान् सम्बन्धान् दृढ़यित् मेलनमिद महत्वयक्त वर्तते जापानस्य स्वीय समकक्षेण सार्धं संवादावसरे नेतृभ्यां भारत प्रशान्त क्षेत्रं सुरक्षितं समृद्धं च विधातुं क्षेत्रमिदं मुक्तक्षेत्रत्वेन संघोषणाया समाह्वानं कृतम् तत्रैव मलेशियाया प्रधामन्त्रिणा साधं द्विपक्षीयं संवादमाचरन् प्रधानमन्त्री विवादास्पद इस्लामिक उपदेशकस्य जाकिर नाइकस्य प्रत्यर्पण विषयं समेत्य नैकान् विषयान् परिचर्चितवान्

राष्ट्रपतिना रामनाथकोविन्देन प्रधानमन्त्रिणा नरेन्द्रमोदिना शिक्षका वर्धापिता शिकक्ष दिवसोपलक्ष्ये अद्य नवदिल्यां राष्ट्रपतिना रामनाथ कोविन्देन ष्ट्वित्वारिंशत् शिक्षका शिक्षक सम्मानेन सम्मानिता छात्राणां जीवने अथ विद्यालयीय शिक्षायां गुणवत्ताम्पपादयित् कृत विशिष्ठ योगदान अभिलक्ष्य शिक्षका इमे पुरस्कृता कार्यक्रमं सम्बोधयन् राष्ट्रपति न्यगादीत् बालाना यूना चेत्युभयो चारित्रिक मानसिक बौद्धिकेति सकल विकासे शिक्षकाणां विद्यालयीय प्रभावस्य महत्वयुक्ता भूमिका भवति शिक्षका बालकेष् अन्शासन सम्मान स्वाभिमानादीनां मौलिकोत्तरदायित्वानां भावना भरणं कुर्वन्त् इति राष्ट्रपति अध्यर्थयत् अमुनोक्तं यत् डॉ सर्वपल्ली राधा कृष्णनो न केवलं महान् दार्शनिक लेखक राजनेता चैवासीत् प्रत्युत असौ अनन्य सामान्य शिक्षकोऽपि आसीत्

स्पर्धायामस्यां विगत दशवर्षेभ्य उपान्त्यचक्रं प्रवेशयन्तीयं प्रथमा सर्वाभ्य कनिष्ठा क्रीडिकारूपेण ख्यातिमलभत् इति वार्ताः